अस्य श्भारम्भ प्रधानमन्त्री नरेन्द्र मोदी विधास्यति भारते गत सप्ताहात् निरन्तरं प्रतिदिनं विंशतिसहस्रतो न्यूनानि कोरोना प्रकरणानि प्रधानमन्त्री नरेन्द्र मोदी दृश्यश्रव्यसंवाद प्रजालिकया शनिवासरे सायं प्रारम्भ इत्याख्यं स्टार्ट अप इण्डिया अन्ताराष्ट्रियं सम्मेलनं सम्बोधयिष्यति डॉनल्ड ट्रम्प वारद्वयं महाभियोग प्रत्यक्षकर्तृत्वेन अमेरिकाया प्रथम राष्ट्रपति जात अद्य अशेषे देशे मकर संक्रान्ति पोंगल भोगाली उत्तरायणी बिह पौषपर्वाणि सोत्साहं आमान्यन्ते

अस्य श्भारम्भ प्रधानमन्त्री नरेन्द्र मोदी विधास्यति देशे विश्वस्य बृहत्तमस्य सूच्यौषध दानाभ्यासस्य कार्यक्रम सौविध्य रूपेण प्रचलति

असमराज्यत गोवापर्यन्तम् एवं च जम्मूकाश्मीरत केरलपर्यन्तं सूच्यौषधानि सम्प्रेषितानि राष्ट्रिय प्राथमिकता सूच्यन्सारं सूच्यौषधि पप्रथमं स्वास्थ्यकर्मिणां अग्रिमाया पंक्त्या कर्मचारिणां कृते प्रदास्यते सहैव सूच्योषध सत्रे प्रतिदिनं प्रायश शत जना अनेन लाभान्विता भविष्यन्ति

साम्प्रतं देशे महामार्या स्वस्थताप्रशितता संवध्य पञ्च दवि दशमलवोत्तर षण्णवतिमिता सञ्जाता

तट्रैव संक्रमितानां प्रतिशतता इदानीं द्वि दशमलव शून्यं त्रि प्रतिशतं संवृत्ता अपि च षड्चत्वारिशदधिकनवशतोत्तर षोडशसहस्रं नूतनानि प्रकरणानि प्रकाशे अधिगतानि इति प्रधानमन्त्री प्रारम्भ प्रधानमन्त्री नरेन्द्र मोदी दृश्यश्रव्यसंवाद प्रजालिकया शनिवासरे सायं प्रारम्भ इत्याख्यं स्टार्ट अप इण्डिया अन्ताराष्ट्रियं सम्मेलनं सम्बोधयिष्यति द्विदिवसात्मकस्य अस्य सम्मेलनं वाणिज्योद्योग मन्त्रालयद्वारा विधीयते ट्रम्प महाभियोग डॉनल्ड ट्रम्प वारद्वयं महाभियोग प्रत्यक्षकर्तृत्वेन अमेरिकाया प्रथम राष्ट्रपति जात अमेरिकी संसदि अभवन् गत सप्ताहे आक्रमणं ध्यात्वा संसद निम्न सदनेन ट्रम्पे महाभियोगस्य प्रस्ताव पारित

ध्यातव्यमस्ति यत् संसदः आक्रमणे पञ्च जनाः मृत्य् उपगताः आसन् महाभियोग प्रस्तावे सीनेट् इति सदने मासस्यास्य विंशति दिनांकात् पूर्व चर्चा न भविष्यति चीन वुहान विश्व स्वास्थ्य संघटनस्य दलमेकं चीनदेशस्य वुहान नगरं संप्राप्स्यति दलमिदं अस्या महामार्या तथ्यानाम् अन्वेषणाय गतवत् अस्माकं पेइचिंग वार्ताहर प्रोक्तवान् यत् राष्ट्रिय स्वास्थ्य मिशन इत्यस्य अधिकारिण प्रतिपादितवन्त यत् हेबेई प्रान्तस्य केन्द्रे व्हानप्रान्ते दलस्य सदस्यानां गमनागमनं प्रतिषेध व्यवस्था वर्तते तै निगदितं यत् चीनप्रान्तस्य मध्यभागे कोविड महामार्या पञ्चदशाधिकैकशतं रोगिण प्राप्ता ये सर्वाधिका संख्यायां सन्ति इति

हय प्रधानमन्त्रिण सुरक्षा सम्बदध मन्त्रिमण्डलं समित्या उपवेशने विमान क्रयणाय अन्मति प्रदत्तासीत् रक्षामन्त्रिणा राजनाथसिंह प्रावोचत् यत् अस्मात् भारतीय रक्षा विनिर्माण क्षेत्रे आत्मनिर्भरतायै सकारात्मकं परिवर्तनं भविष्यति अपि च विमानमिदं अत्याधनिक वर्तते इतः प्राक् अस्य प्रयोग भारते न अभवत् तेन इदमपि प्रतिपादितं यत् हिन्द्रस्तान ऐरोनॉटिक्स लिमिटेड इत्यनेन नासिक बंगलूरुप्रान्तयोः योद्धविमान निर्माणाय नवीन सौकर्य प्रदत्तम् हिन्दुस्तान ऐरोनॉटिक्स लिमिटेड इति भारतीय वाय्सेनायै एम का वन ए इत्यस्य उत्पादनं करिष्यति एवञ्च आवश्यकता समये भारतीय वाय् सेनायै समर्पयिष्यति

आकाशवाण्या सह विशेष संवादे डॉक्टर सिवानेन प्रोक्तं यत् इसरो इत्यस्य नेतृत्वे प्रचाल्यमाणानां कार्यक्रमाणां अपरं वैशिष्ट्यं वर्तते अल्पेन व्ययेन कार्यक्रमाणां पूर्ति भारतेन यदा स्वकीये प्रथमे प्रयासे मंगलग्रहं यावत् प्राप्ते लक्ष्यं सम्प्राप्तं तदा प्रधानमन्त्रिणा इदमपि उक्तमासीत् हॉलीव्डचलचित्रात् ग्रब्रिटी इत्यस्यात् अपि न्यूनव्ययेन अस्माकं वैज्ञानिकै लक्ष्यं सम्प्राप्तं

एकस्यां ज़प्तौ दग्धोत्पाद मत्स्य पश्पालन मन्त्रालयदवारा प्रोक्तं यत् अध्नावधि दशस् राज्येष् एवियन् इन्फल्येंजा प्रकरणानि प्रकाशमधिगतानि सन्ति पक्षिणाम् अपमृत्यप्रकरणानि जम्मूकाश्मीरस्य गान्दरबलजनपदे झारखण्डस्य च चत् जनपदेष् दृष्टानि मन्त्रालयेन राज्यानि अस्या स्थिते निराकरणाय स्वास्थ्य वन्यमन्त्रालयाभ्यां सार्ध सहयोगं कर्त् निर्दिष्टानि तथा च राज्यानि अस्य प्रसरणम् अवरोदध्ं स्रक्षोपायान् स्निश्चितान् कुर्य्

कौशलविकासमन्त्रालयान्सारि अस्मिन् चरणे अभिनववयसा कोविड् सम्बद्धै च कौशलेष् विशेषावधानं भविष्यति

देशस्य राष्टपतिना उपराष्ट्रपतिना प्रधानमन्त्रिणा च देशवासिन समभिनन्दिता एकस्मिन् ट्वीटालेख्ये राष्ट्रपतिना प्रोक्तं यत् इदं पर्व समाजे सौहार्दस्य भावनाया सञ्चारं कारोतीति एवं अस्मात् देशे समृद्धि प्रसन्नता च भविष्यति फिल्मोत्सव सत्यजीतर भारतस्य एकपञ्चाशत्तमे अन्ताराष्ट्रिय फिल्म समारोहे महान् निर्देशक सत्यजीतराय वर्याय तस्य सुप्रसिदध चलचित्रमाध्यमेन श्रदधाजलि अर्पयिष्यते सुचना एवञ्च प्रसारण मन्त्रालयस्य सचिव अमित खरे वर्येण गतवर्षे स्वर्ण जयन्ती आयोजने अस्या सूचनाया घोषणा विहिता आसीत् सत्यजीतरायेन कथचलचित्राणि वृत्तचित्राणि लघ्चलचित्राणि समेत्य षड्ञत्रिंशत् चलचित्राणि निर्देशितानि